तमिलनाडो मामल्लापुरम् नगरे स प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना समं द्वितीये अनौपचारिकोपवेशने सहभागितां विधास्यति देशद्वयमध्ये रणनीतिक व्यापारिक सांस्कृतिक सम्बन्धानां भूयोऽपि समुन्नयनं सम्मेलनस्यास्य मुख्यमुद्देश्यमस्ति नेतृद्वयस्य मध्ये दिवसद्रयात्मकं सम्मेलनमेतत् समुद्दिश्य सम्प्रति सांस्कृतिकं मामल्लापुरम् नगरं रोचकपूर्णरीत्या समलंकृतं विद्यते सहक प्रशासनेन तत्र नक्किस्तरेष सुरक्षा प्रबन्धा अपि प्रकल्पिता सन्ति जम्मू कश्मीरम् जम्मु कश्मीर प्रशासनेन निगृहीता त्रयो राजनेतार सम्प्रति विमृक्ता सन्ति त्रयोऽपि इमे नेतार विगत ऑगस्ट मासस्य पञ्चमे दिनाड़के तद्राज्याय विशिष्ट स्तर प्रदायकस्य सप्तत्यधिक त्रिशत तमस्य अन्च्छेदस्य अपवारणानन्तरं निगृहीता आसन् आधिकारिक सूचनान्ग्णं यावरमीर न्रमोहम्मद शोएब लोनश्चेति त्रयो नेतार विम्क्ता मीर प्राक्तन पीडीपी दलविधायक लोन उत्तरकश्मीर पूर्व कांप्रेस् जनपदाध्यक्ष नूरमोहम्मदश्च नध्यमल् कॉन्फ्रेन्सदलस्य कार्यकर्ता अवर्तन्त

एतद्रिषयको निर्णयश्च तत्रत्य राज्यपालेन श्रीमता सत्यपालमिलकेन अस्मिन् सप्ताहारम्भे विहित आसीत् एवमेव तत्र उच्चविद्यालयीया महाविद्यालयीयाश्व परीक्षा अस्य मासस्य अन्मिसप्ताहे समायोजयिष्यन्ते राज्यप्रशासनेन राज्य शिक्षा मंडलं महाविद्यालया विश्वविद्यालयाश्च समुदीरितानि यत् त राज्ये शीताऽवकाशात् पूर्वं सर्वप्रकारिका परीक्षा समायोजनीया